वित्तमन्त्रिणा निर्मलासीतारमणेन केन्द्रीय सर्वकारस्य वित्तीय प्रस्तावान् प्रभावीकर्त्म् अद्य इद विधेयक प्रस्तुतम्

वार्ताः विशदीकृत्य

संघीय मन्त्री प्रकाश जावडेकर निवेदितवान् यत् जनै अवश्यमेव कोविड सूच्यौषधम् गृह्यताम् यतो हि इदम् कोविड संक्रमणस्य विरुद्धं रक्षकरूपेण अस्ति तेन स्पष्टीकृतं यत् देशे सूच्यौषधस्य अल्पता नास्ति स अवादीत् यत् गतदिने सूच्यौषधस्य द्वाविंशत् लक्षं मात्राणि प्रदत्तानि मंत्रिमण्डलम् अन्बन्धपत्रम् अद्य संघीय मन्त्रिमण्डलेन भारतस्य संघलोकसेवाआयोगस्य अफगानिस्तानस्य लोकसेवा आयोगस्य च मध्ये एकं पारस्परिक सहमति पत्रम् हस्ताक्षरितम् अनेन द्वयोरपि देशयो आयोगयो मध्ये सम्बन्धादृढा भवन्ति अपि च देशयो मध्ये नियुक्तिक्षेत्रे अन्भवाना गोपनीय प्रकृते सूचनाना प्रपत्राणा च आदानप्रदानस्य सौविध्यम् भविष्यति अनेन सह लिखितपरीक्षाया संगणकाधारित परीक्षाया कृते सूचनाप्रौद्योगिक्या क्षेत्रे साहाय्यार्थम् अपि विचार विनिमय भविष्यति

केन्द्रियस्वास्थ्यमन्त्रालयेन निगदितं यत् गतदिने एव त्रिपंचाशदृत्तर द्वात्रिंशत् लक्षमितानि सूच्यौषधानि दत्तानि आहत्य महामार्या स्वस्थतामिति पंचनवति दशमलव षड्सप्त प्रतिशतात्मिका जाता एकोनत्रिंशति अधिक रोगिण अहोरात्रे स्वस्थीभूता मन्त्रालयेन उक्तं यत् सम्प्रति आराष्ट्रे पंचचत्वारिंशत् सहस्राणि प्रकरणानि उपचाराधीनानि सन्ति एषा संख्या सम्पूर्णप्रकरणानां समक्षं द्वि दशमलव षण्णवति प्रतिशतम् एव अस्ति सम्पूर्णेषु प्रकरणेषु अशीतिप्रतिशतम् महाराष्ट्र पंजाब कर्णाटका गुजरात छत्तीसगढ तमिलनाड् प्रदेशोभ्य एव सन्ति

उक्तं च ऋणस्थगनावधौ प्रतिदेयात् मुक्ति असम्भवम् न्यायमूर्तिन अशोकभूषणस्य अध्यक्षतायां शीर्षन्यायालयेन एषा याचिका निरस्तीकृता उक्तं च न्यायालयेन यत् प्रतिदेयस्य पूर्णत निवृत्ति असम्भवमिति गडकरी केन्द्रियमंत्री नितिनगडकरी उक्तवान् यत् वंशवृक्षोद्योगसम्बन्धिनाम् उत्तराधायीनां सहकारेण अयम् उद्योग पंचविंशतित त्रिंशत् सहस्रकोटिमितस्य भवन्नस्ति अयं मन्त्री अद्य आभासीय उपवेशने वंशवृक्षसंबन्धितां संगोष्ठीं संबोधयन् आसीत्

इयं दुर्घटना ग्वालियरस्य पुरानी भवानी इति क्षेत्रे जाता अष्टमहिला त्रिचक्रिकाया चालकश्च दुर्घटनास्थले एव मृता अन्ये च उपचारावधौ व्रणिताश्च चिकित्सालयेषु उपचाराधीना सन्ति प्रधानमन्त्रिणा नरेन्द्रमोदिना सह म्ख्यमन्त्रिणा शिवराजसिंहचौहानेन अपि शोकसंवेदना प्रकटिता राज्यकेन्द्रप्रशासनाभ्यां मृतकेभ्य आहत्य षल्लक्षरूप्यकाणि आहतेभ्य लक्षैकमितानि रूप्यकाणि च दानाय घोषणा कुता जर्मनी जर्मनीदेशेन पूर्णपिधानस्य अवधि संवर्ध्य आगामीमासस्य अष्टादशदिनांकं यावत् कृत

एंगेला मार्किलेन प्रोक्तं यत् अस्मत् देश सम्प्रति न्तनस्य रोगस्य क्रोडे अस्ति

इति तु साक्षात् इतिहासमस्ति अद्यप्रधानमन्त्री सांसदान् संबोधयन् आसीत्

वित्तमन्त्रिणा निर्मलासीतारमणेन केन्द्रीय सर्वकारस्य वित्तीय प्रस्तावान् प्रभावीकर्त्म् अद्य इदं विधेयकं प्रस्त्तम् भाजपादलीय राजेन्द्र अग्रवाल प्रावोचत् यत् निर्धनानां कृषकाणां श्रमिकाणां सैनिकाणां च कल्याणाय प्रधानमन्त्रिण नेतृत्वे नैका पदक्षेपा समुत्थापिता इदानीं भारतम् आत्मनिर्भरताया सर्वेष् पक्षेष् अग्रसर अस्ति राजनाथसिंह जनसभा अद्य रक्षामन्त्री राजनाथ सिंह असम क्षेत्रस्य लामडिंग क्षेत्रे एकां जनसभां सम्बोधितवान् अस्मिन् अवसरे तेन प्रोकृतं यत् असमवासिन असमराज्यस्य च कलाया संस्कृतेश्च रक्षा भाजपादलस्य प्राथमिकतायाम् अस्ति मन्त्रिणा प्रोक्तं यत् राज्ये मुख्यमन्त्रिण सर्बानन्द सोनोवालस्य नेतृत्वे विगत पंचवर्षे विकासकार्याणि द्र्तगत्या जातानि अद्य असमराज्ये कांग्रेसदलस्य असमगण परिषद अन्येषां दलानां च अपि जनसभा जाता अपि च अन्ते क्रीडावार्तायाम् त्रि एकदिवसीय क्रिकेट क्रीडायां प्रथमसंघर्ष प्णेनगरे इंग्लैण्डभारतयार्मध्ये प्रचलति